महाराष्ट्रे नृतनप्रशासन संरचना विषयिण्यश्चाः सम्प्रति नवदिल्लीं प्रति स्थानान्तरिताः

राज्यसभावायुप्रदूषणम् केन्द्रीय पर्यावरण मन्त्री प्रकाश जावडेकरः प्रावोचत् यद् देशे वायु प्रदूषणस्य नियन्त्रणार्थं नगर वनानि विद्यालयोद्यानानि जनानां सहभागिता च नितरां समपेक्षितानि सन्ति देशे विशिष्य दिल्ल्यां विगत दिवसेष् समापतितं वायू प्रद्षणस्य घातकस्तरम् अभिलक्ष्य सः गतदिवसे राज्यसभायां ध्यानाकर्षण प्रस्तावस्य उपस्थापनार्थम् आह्वानं विदधाति स्मा महाराष्ट्रप्रशासनसंरचना महाराष्ट्रे न्तनप्रशासन संरचना विषयिण्यश्चाः सम्प्रति नवदिल्लीं प्रति स्थानान्तरिताः संदर्भेस्मिन् गतदिवसे नवदिल्ल्यां निरन्तरं नैकानि मन्त्रणोपवेशनानि शिवसेना कांग्रेस राष्ट्रवादिकांग्रेस दलीयैः राजनेतृभिः समनृष्ठितानि स्त्रैः विज्ञाप्यते यत् कांप्रेस् कार्यकारिसमित्या उक्तदलत्रयस्य प्रस्तावितायै संयुत्यै द्यः स्वीया सहमतिः प्रदत्तास्ति पश्चात् दिल्लीतः मुम्बई प्रतिनिवृत्तौ शिवसेनाप्रमुखः उद्धव ठाकरे तत्तनयः आदित्य ठाकरे च राष्ट्रवादि कांग्रेस् प्रमुखेण शरद पवारेण सह गतरात्रौ स्वीयावासे मन्त्रणामाचरितवन्तौ अत्रान्तरे अद्य प्रातः शिवेसनाप्रमुखः मुम्बय्यां स्वदलीयान् विधायकान् सम्मिलति प्रधानमन्त्रीमन की बात प्रधानमन्त्री नरेन्द्र मोदी रविवासरे प्रातः एकादश वादने मन की बात इत्यस्मिन् कार्यक्रमे जनानां प्रतः स्वीयं मनोगतं प्रकाशयिष्यति आकाशवाणीतः प्रतिमासं प्रसार्यमाणस्य अस्य कार्यक्रमस्य अयम् ऊनषष्टितमः अड़कः विद्यते अस्य प्रसारणम् आकाशवाणी द्रदर्शनयोः सर्वाभिरपि वाहिनीभिः विधास्यते क्रिकेट् कोलकातायामु ईडन् गार्डन्स् क्रीडाङ्गणे अद्यापराह्ने भारत बांग्लादेशयोर्मध्ये प्रथमा क्रिकेट् निकष स्पर्धा समारभते स्पर्धायामस्याम् ऐदम्प्राथम्येन पाटलवर्णस्य कन्दुकस्य प्रयोगो भविष्यति स्पर्धेयम् अद्य एकवादनात् आरप्स्यते क्रीडाद्रयात्मिकायाः क्रिकेट् शृङ्खलायाः अस्याः द्वितीयं द्वन्द्वमपि आहोरात्रिकं भविष्यति